केन्द्रेण राज्यानि निर्दिष्टानि यत् कोविशील्ड सूच्यौषधस्य प्रथम द्वितीय चरणयो मात्राप्रदानस्य मध्ये अष्ट सप्ताहस्य अन्तरालं अवश्यं पालयन्तु

केन्द्रशासिते जम्मूकाश्मीरे सुरक्षाबलैः अद्य चत्वारः आतङ्कवादिनः व्यापादिताः सप्त षष्टितमानाम् राष्ट्रिय फिल्म पुरस्काराणाम् अद्य घोषणा जाता विगतवर्षाय गान्धी शान्ति पुरस्कार बंगबन्धु शेख मुजिबुर रेहमानाय प्रदास्यते

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

अद्य प्रधानमन्त्री विश्वजलदिवसस्य अवसरे जलशक्ति अभियानस्य ंकैच द रेन इत्यस्य दुश्यश्रव्यप्रणात्या श्भारम्भम अकरोत अस्य अभियानस्य घोषः अस्ति जहां भी गिरे जब भी गिरे वर्षा जल एकत्र करें अर्थात् यदापि यत्रापि वा पतेत् जलस्य एकत्रणं कुर्यात् प्रधानमन्त्री प्रसन्नतां प्रकटयन् अवदत् यत् ग्रामीणजनाः वर्षाजलस्य संरक्षणाय प्रयत्नं कुर्वन्ति अन्यान् अपि शिक्षयन्ति श्रीमान् मोदी सबलं प्रत्यपादयत् यत् जलं धनस्य अपेक्षया बहुमूल्यम् अस्ति परन्त् जलसंरक्षणस्य सर्वत्र न्यूनता दृश्यते तेन इदम् अपि प्रोक्त यत् प्रशासनं जलप्रबंधनम् प्रति संरक्षणं च प्रति कार्यं करोति प्रधानमन्त्री सबलं प्रोक्तवान् यत् यदि भारतं वर्षाजलस्य सम्यक्तया प्रबन्धने सफलं भवति तर्हि अनेन देशस्य भूजले निर्भरता अपि न्यूना भविष्यति प्रधानमन्त्रिणः उपस्थितौ जलशक्तिमन्त्री मध्य प्रदेश उत्तर प्रदेशाभ्यां मुख्यमंत्रिणौ केन बेतवा सम्पर्कपरियोजना संबद्धे सहमतिपत्रे अपि हस्ताक्षराणि कृतवन्तः नदीनां योजनस्य राष्ट्रिययोजनान्तर्गतम् इयं प्रथमा परियोजना भविष्यति अनेन उपक्रमेण प्रतिवर्ष द्विषष्टय्तरदशलक्ष हेक्टेयरमितायाः कृषिभ्मेः सेचनं प्रायशः द्विषष्टिलक्षमितेभ्यः जनेभ्यः पेयजलस्य आपूर्तिः च अपि भविष्यति केन्द्रम् केन्द्रेण राज्यानि केन्द्रशासित प्रदेशाश्च निर्देष्टानि यत् कोविशील्ड नाम्न कोरोना सूच्यौषधस्य प्रथम द्वितीय चरणयो मात्राप्रदानस्य मध्ये अष्ट सप्ताहस्य अन्तरालं अवश्यं पालयन्त् अयं निर्देश राष्ट्रिय प्राविधिक प्रतिरोधि परामर्श समूहेन अथ राष्ट्रिय कोरोना सृच्यौषध प्रबन्धनसमूहेन प्रख्यापित अस्ति अयं संशोधित सूच्यौषधप्रदानस्य नियम केवलं कोविशील्ड सूच्यौषधाय एव प्रवर्तयिष्यते न त् कोवैक्सीन इत्यस्मै सूच्यौषधाय स्वास्थ्यमन्त्रालयेन अस्य नियमस्य अवधानेन परिपालनाय राज्यानि कथितानि

देशे साम्प्रतं यावत् पंचषष्टिसहस्रोत्तर पंचाशत् लक्षाधिकचत्ः कोटिजना सूच्यौषधं प्राप्तवन्त विगते अहोरात्रे द्विषष्टि सहम्रोत्तर चतुर्लक्षमितानि सूच्यौषधानि प्रदत्तानि स्वास्थ्यमंत्रालयानुसारि देशे इदानीं कोरोना महामारीत स्वस्थतामिति सप्तपंचदशमलवोत्तर पंचनवतिमिता अस्ति विगतास् चत्र्विशतिहोरास् प्रायश एकविंशतिसहस्रं जना कोरोनात स्वस्थीभूता

विगतास् चतुर्विंशतिहोरास् उक्तेष् राज्येष् अशीति दशमलव पंच प्रतिशतं नवानि प्रकरणानि प्टिं गतानि इत्थं नूतन संक्रमणस्य संख्या भूयोपि नवशताधिक षट चत्वारिंशत् सहस्रमिता समंकिता राजस्थान कर्फ्यू राजस्थानसर्वकार कोविडप्रकरणानां संख्यायाम् वृद्धिकारणेन अष्टस् नगरेष् अद्य प्रभृति रात्रौ गमनागमनरोध प्रवर्तनस्य निर्णयम् अकरोत् अयं निर्णय मुख्यमन्त्रिण अशोक गहलोतस्य आध्यक्ष्ये जाते सम्मेलने स्वीकृत

आयोगानुसारि केषुचिद् स्थानेष् निर्वाचनात् पूर्व दुष्टजनाः बाइकयानानां दुरुपयोगं कुर्वन्ति निर्वाचनम् असमे पश्चिम बंगाले च विधानसभाया निर्वाचनानां तृतीय चरणाय केरल तमिलनाडु पुद्च्चेरीति राज्यत्रये प्रथमअंतिम चरणेभ्यश्च कृते सज्जता जवीयस्या गत्या प्रवर्तन्ते एतदर्थं प्रत्याशिनां नामांकन प्रत्यावर्तनस्य अद्य अन्तिम दिनांक अस्ति नामांकन प्रत्यावर्तनस्य अनन्तरम् एव तत्तद राज्येष् प्रत्याशिनां संख्या अंतिमं रूपं प्राप्स्यति तत्रैव असम पश्चिम बंगालयो प्रथम द्वितीय चरणयो कृते निर्वाचनप्रचार परां काष्ठां भजति विभिन्नानां राजनैतिकदलानां वरिष्ठा नेतार मतदातृन् निजदलस्य समर्थने मतदानाय आक्रष्ट् प्रयतन्ते अपरत्र पश्चिम बंगाले पंचम चरणात्मक निर्वाचनम् आलक्ष्य नामांकन पत्र प्रपूरणस्य श्व अवसान दिवस अस्ति

आतङ्कवादिनां सुरक्षाबलानां च मध्ये अद्य दक्षिणकाश्मीरस्य मनिहालक्षेत्रे अयं सङ्घर्षः जातः सुरक्षाबलानुसारि गुप्तस्त्रेभ्यः प्राप्तसूचनानुसारं यदा अन्वेषणाभियानं प्रचालितं तदा तत्र आतंकवादिनः ग्लिकाप्रहारं प्रारब्धवन्तः प्रत्युत्तरे अस्माकं सैनिकाः चत्वारः आतंकवादिनः व्यापादितवन्तः रक्षामन्त्रालय रक्षामन्त्रालय अद्य महेन्त्रा डिफेन्स सिस्टम लिमिटेड समवायेन समं एकं अनुबन्धपत्रं हस्ताक्षरितवान् एतदनुसारं उक्तसमवाय भारतीय स्थल सेनां अतोपि सुदृढयित् विशिष्टानां स्विधासम्वलितानां वाहनानाम् आपूर्तिं करिष्यति अत्र अनुबन्धे षट् पंचाशत् उत्तर सहम्र कोटि मुद्राया व्यय भविष्यति

श्रेष्ठ हिन्दीचलचित्रप्रस्कार छिछोरे चलचित्राय प्रदत्त ग्मनामी इति चलचित्र श्रेष्ठ बंगालीचलचित्रत्वेन प्रस्कृतम् कंगना राणावत पंगा मणिकर्णिका इति द्रयो चलचित्रयो कृते श्रेष्ठ अभिनेत्रीरूपेण सभाजिता

विगतवर्षाय बंगबन्धु शेख मुजिब्र रेहमानाय अपि च ऊनविंशत्युत्तर द्वि सहम्रतम वर्षाय ओमानस्य दिवंगताय सुल्तानाय क्रबूस बिन सैयद अल सैद इत्यस्मै गान्धी शान्ति पुरस्कार प्रदास्यते